महाराष्ट्रे शिवसेनाध्यक्षः उद्धव ठाकरे अद्य नवनिर्वाचितानां विधायकानां मन्त्रणागोष्ठीं समाकारितवान् अस्ति भारतीय प्राशासनिक सेवाधिकारिणौ गिरीश चन्द्र मुर्मू आर्केमाथुरश्च क्रमशः जम्मू कश्मीर लद्दाखयोः उपराज्यपालत्वेन नियुक्तौ स्तः

हरियाणा प्रशासनसंरचना हरियाणायां भारतीयजनतापार्टी जननायकजनतापार्टीति दलयोर्मध्ये सम्भूय नूतन प्रशासन संरचनायै सहमतिर्जातास्ति

एतद् विषयिणी उद्घोषणा च गतरात्रौ जेजेपी दलनेत्रा दृष्यन्त चौटाला वर्येण समं मन्त्रणोपवेशनाद् अनन्तरं भाजपा दलाध्यक्षेण श्रीमता अमित शाहेन समाचरिता

महाराष्ट्रमनूतनप्रशासनम् अपरतो महाराष्ट्रे शिवसेनाध्यक्षः उद्धव ठाकरे अद्य मुम्बय्याः बान्द्रोपनगरस्थे मातोश्री इत्यभिधे ठाकरे आवासे नवनिर्वाचितानां विधायकानां मन्त्रणागोष्ठीं समाकारितवान् अस्ति

राष्ट्रपति भवनात् प्रसारितायाम् आधिकारिक विजप्तौ संसूचितं यत् पीएस्श्रीधरन् पिल्लई मिजोरमस्य न्तन राज्यपालत्वेन नियुक्तोऽस्ति निवर्तमानो जम्मूकश्मीरराज्यपालः सत्यपाल मलिकः सम्प्रति गोवा राज्यपालपदम् अंगीकरिष्यति

पूर्व केन्द्रीय अरब सागर प्रान्ते धृतकेन्द्रायाः अस्याश्चण्ड वात्यायाः कारणात् कर्णाटक गोवा दक्षिणोकोंकण क्षेत्रेष् मध्यमो वृष्टिपातः प्रबलो झञ्झावातश्च सम्भाव्येते